आय व्ययसङ्कल्पप्रपत्रे रक्षापरिव्यये सप्त पञ्च दशमलवोत्तर अष्टादश प्रतिशतं वृद्धि कृत्वा आधुनिकीकरण क्षेत्रे ऐतिहासिको निर्णयो विहित ओमानदेशेन भारतस्य कोरोना प्रतिरोधि सूच्यौषध प्रेषणाय आभार प्रकटित प्रोक्तं च यत् अयं प्रकल्प अस्माकं सर्वकारयो जनानां च मध्ये सम्बन्धान् दृढीकरिष्यति संयुक्तराष्ट्रसुरक्षापरिषद् अद्य म्यांमारे सैन्यद्वारा विहित सत्तापरिवर्तनम् अभिलक्ष्य चर्चा विधास्यति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्त पाणिपाद च यथासमयं प्रक्षालयन्तु

जीवनसरलीकरणाय च स्थानं प्रदास्यति

रक्षा पूंजीगतव्यय आय व्ययसङ्कल्पप्रपत्रे रक्षापरिव्यये सप्त पञ्च दशमलवोत्तर अष्टादश प्रतिशतं वृद्धि कृत्वा आध्निकीकरण क्षेत्रे ऐतिहासिको निर्णयो विहित मूलराशे परिव्यये वृद्धि सायुध सैन्यानां आध्निकीकरणे विकासाय ऐतिहासिकी

वित्तमन्त्रिणा आत्मनिर्भरभारतस्य लक्ष्यमुद्दिश्य संकल्पपत्रमिदं प्रस्त्तम्

सुरक्षा परिषद अद्य म्यांमारे परिस्थितिम् उद्दिश्य चर्चां विधास्यति अवधेयास्पदं विद्यते यत परिवेशि म्यांमार राष्ट्रे बलात् सैन्य शासनम् जातम्